हरियाणायाः पूर्व मुख्यमन्त्री वरिष्ठः काँप्रेस नेता च भुपिन्दर सिंह हुड्डा जम्मू कश्मीरात् सप्तत्यधिक त्रिशत तम सांवैधानिक धारायाः अपाकरण विषयकं केन्द्रस्य निर्णयं समर्थितवान् अपि च देशस्य नैके प्रान्ताः सम्प्रति प्रचण्ड वृष्टयापदं सम्मुखीकुर्वन्ति

जम्म्कश्मीर स्थिति जम्मू कश्मीरे अद्य श्रीनगरस्य नवत्यधिकाः शतं प्राथमिक विद्यालयाः पुनरुद्वाट्यन्ते प्रशासनेन बालानां स्रक्षां सुनिश्चेतुं व्यापकाः प्रबन्धाः प्रकल्पिताः सन्ति तत्रत्यः शासकीयः प्रवक्ता रोहित कंसलः अवादीत् यद् गतदिवसे कश्मीरोपत्यकायाः पञ्चाशद आरक्षि स्थानक क्षेत्रेष् प्रतिबन्ध शैथिल्यं प्रदत्तम् तेन स्पष्टीकृतं यद् आगमिष् दिवसेष् स्थितौ प्रगतिं परिलक्ष्य शैथिल्यावधिः स्वयमेव वर्धयिष्यते सः व्यज्ञापयत् यदिदानीं यावन्न खल् कृतश्चिदपि काचिद् अप्रिया घटना संसूचिताऽस्ति

प्रतिरक्षा सूत्राणि आकाशवाणी व्यज्ञाययन् यद् भारतीय सैन्यैरपि पाक प्रहाराणा समुचितं प्रत्युत्तरं प्रदीयते एतस्मिन् संघर्षे नेदानीं भावत् भारतीय पक्षतः काचिद् हतिराहतिर्वा सूच्यते प्रधानमन्त्री भूटानम् प्रधानमन्त्री श्रीनरेन्द्र मोदी भूटानस्य दिवस द्वयात्मिकाम् आधिकारिक यात्रां सफलतया सम्पाद्य ह्यो गृहदेशं प्रति निवृत्तः ततः पूर्व ं तदीय सत्कारे भूटान भूपतिना गतदिवसे प्रीतिभोजः समायोजितः श्रीमोदिनो यात्रायामेतस्यां देशद्रयेन जलविद्युत्केत्रातिरिक्त नैकेष् सन्धिष् हस्ताक्षर निधाय स्वकीयान् द्विपाक्षिक सम्बन्धान् भूयोऽपि सम्न्नेत् निर्णयः कृतः

गतदिवसे रोहतके जनसभामेका सम्बोधयन् हुड्डा व्याहरत् यद् यदि नाम केन्द्र कमपि सार्थकं समुचितं च पदक्षेपं गृह्वाति तहिं सः तस्य निर्णयं सर्वथा समर्थयिष्यति तेन स्पष्टीकृत यदसौ राष्ट्रिय हित विषये न कदापि कथमपि सामञ्जस्य विधास्यति वृष्टिः देशस्य नैके प्रान्ताः सम्प्रति प्रचण्ड वृष्टयापदं सम्मुखीकुर्वन्ति प्राकृतिक विपत्याऽनया गतदिवसे हिमाचलप्रदेशे उत्तराखण्डे पञ्चाबे च त्रिंशज्जनाः मृताः द्वाविंशतिश्च विलुप्ताः संजाताः सूच्यन्ते